राष्ट्रपति श्रीरामनाथ कोविन्द गतदिवसे आईसलैण्ड स्विट्जरलैण्ड स्लोविनिया चेति त्रयाणां यूरोपीय देशानां अधिकारिक यात्रां समारभत

प्रधानमन्त्री सम्मेलनम् प्रधानमन्त्री श्रीनरेन्द्र मोदी जगति नैकेषां भूभागनां मरुस्थलीकरणं विरुध्य सम्प्रति ग्रेटर नोएडायाम् अनुवर्तमाना चतुर्दशी संयुक्त राष्ट्रिय विमर्श गोष्ठीम अद्योद्रोधयिष्यति अत्रेदम उल्लेख्यमस्ति यत् साम्प्रतं वर्षद्वयाद एतस्य समृहस्य आध्यक्ष्यं चीनतो भारतस्य हस्ते सम्प्राप्तमस्ति संगोष्ठयामस्यां जगत सप्त नवत्यधिक शत देशानां सपाद सप्त सहस्र प्राया प्रतिभागिनो भागमाददाना विद्यन्ते येष् नैके मन्त्रिण शासकीया प्रतिनिधय वैज्ञानिका महिला युवान संघटनानि च समाविष्टानि सन्ति

पूर्वोत्तर राज्यानां मुख्यमन्त्रिभि साधं केन्द्रीयो गृहमन्त्री श्रीअमितशाह सम्मेलनेऽस्मिन् सहभागित्वं विधास्यति दलीय सुत्रै सुचितं यत् नेडा ति संयुते सुदृढ़ीकरणविषये सम्मेलनऽस्मिन् प्रामुख्येण परिचर्चिष्यते

तत्र भारत संयुक्त अरबदेशेन सम्भूय सहायोजको देशो वर्तते